प्रधानमन्त्री नरेन्द्र मोदी स्वामित्व योजनान्तर्गतम् अद्य ई प्रापर्टी अन्तर्जालीय सम्पद इत्यस्य प्रपत्रस्य वितरणं करिष्यति प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य पंचविंशति दिनाड़के आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे जनैः सह स्वविचारान् प्रकटयिष्यति भारते साम्प्रतं यावत् द्वयशीति लक्षाधिक त्रयोदश कोटिमितादपि अधिकजनाः कोविड संक्रमण प्रतिरोधि सूच्यौषधं प्राप्तवन्तः

पीएम सीएम उपवेशनम् प्रधानमन्त्रिणा नरेन्द्र मोदिना आश्वासितं यत कोविड ऊनविंशति इत्यस्याः विरुद्वे संघर्षे केन्द्र प्रशासनं सर्वैः राज्यैः सह अस्ति गतदिने प्रधानमन्त्री अतिमात्रेण संक्रमितानां राज्यानां मुख्यमन्त्रिभिः साकम् एकम् उपवेशनं कृतवान्

अत्र राज्यानां प्राणवायोः आपूर्तेः विषयम् अभिलक्ष्य प्रधानमन्त्रिणा प्रोक्तं यत् प्राणवायोः उत्पादनार्थं आपूर्तये च अनवरतं प्रयासाः क्रियन्ते प्रधानमन्त्री उक्तवान् यत् राज्यैः औषधीनां प्राणवायोश्व अधिक मूल्येष् विपणनस्य अपि परीक्षणं कुर्यात् सममेव सवैंः राज्यैः प्राणवाय् वाहक यानानां निर्बाध प्रचालनम् अपि सुनिश्चीकुर्यात् स्वामित्व पीएम प्रधानमन्त्री नरेन्द्र मोदी स्वामित्व योजनान्तर्गतम् अद्य ई प्रापर्टी अन्तर्जालीय सम्पद इत्यस्य प्रपत्रस्य वितरणं करिष्यति अद्य एकस्मिन् आभासीय समारोहे प्रधानमन्त्री चतुर्लक्षादपि अधिक स्वामित्व धारकेभ्यो इदं प्रपत्रं प्रदास्यति अद्य राष्ट्रिय पञ्चायत राज दिवसः वर्तते अस्मिन्नवसरे अद्य प्रधानमन्त्री राष्ट्रिय पञ्चायत पुरस्काराः एकविंशत्यधिक द्विसहस्राब्दम् एतदपि वितरिष्यति

सूच्यौषधीकरण भारते साम्प्रतं यावत द्वयशीति लक्षाधिक त्रयोदश कोटिमितादपि अधिकजनाः कोविड संक्रमण प्रतिरोधि सच्यौषधं प्राप्तवन्तः एष् षड़षष्टि सहस्राधिक द्वानवति लक्ष स्वास्थ्यकर्मिणः सुच्यौषधस्य प्रथमा मात्राम अपि च ऊनषष्टि लक्षाधिकाः स्वास्थ्य कर्मिणः सूच्यौषधस्य द्वितीयां मात्रां प्राप्तवन्तः मन की बात प्रधानमन्त्री नरेन्द्र मोदी अस्य मासस्य पंचविंशति दिनाङ्के आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे जनैः सह स्वविचारान् प्रकटयिष्यति इयं कार्यक्रमस्य षड्सप्ततितमी श्रृंखला भविष्यति